अस्मिन् उपवध्मावधौ संसत्सत्रस्य सुचारू संचालन सुनिश्चर्त सर्वेषा दलाना समर्थनार्थम् अध्यर्थयिष्यति

संसद शीतकालिक सत्रम् गामि मासस्य त्रयोदश विवस प्रिणताम् एष्यति

महाराष्ट्रम् राजनीति राष्ट्रवादि कांग्रसिपार्टी दल अभिघोषितं यत् राष्ट्रवादि कांग्रसिकांग्रसिशिवसत्तिदलानां संयुत्या महाराष्ट्र स्थायि प्रशासन विरचयिष्यत दलाना मध्य जितभद सम्बद्ध सब्वारमाध्यमीया नुमान निराकृर्वता गतदिन जागपुर राष्ट्रवादिन्कांप्रपार्टी दलस्य अध्यक्षणशरदपवारणिसूचितं यत् तस्य प्रशासनं पञ्चवर्षात्मकं कार्यकालं सम्प्रयिष्यति

जनजातीय विभागस्य मन्त्री अर्जुनमुण्डा औद्घाटनिक कार्यक्रमस्य अध्यक्षतां विधास्यति